प्रधानमन्त्री मन की ात प्रधान मन्त्रिणा श्रीनरेन्द्र मोदिना प्रोक्तं यत् भारतस्य वैविध्यं वैशाल्यं च देशस्य प्रतिजनं गौरवान्वितं करोति आकाशवाण्या मन की आत कार्यक्रम माध्यमेन निज विचारान् जन सम्मुखम्पस्थापयता अम्ना प्रतिपादितं यत् देशस्य विशालता विविधता च देशवासिभ्य प्रेरणास्रोतोरुपे स्त प्रधानमन्त्रिणा दिल्ल्या हनर हा इत्यत्र सद्यस्सम्पन्नां नैर्जी यात्राम् उल्लेखयता भणितं यत् एतद्धि देशस्य विशालताया संस्कृते परम्पराणां भोजनपानयो भावनानां च वैविध्यस्य दर्पणो वर्तते तत्र हा विपण्यां प्रदर्शितानि वस्त्राणि हस्तशिल्पाकृतय भाजनानि अन्योत्पादाश्च समस्तस्यापि भारतस्य कला संस्कृतीनाम् अद्भुतम् अवर्णनीयं च दृश्यम् उपस्थापयन्ति प्रधानमन्त्री प्रावोचत् यत् हनर हा माध्यमेन त्रिलक्ष प्रायेभ्य हस्तशिल्पिभ्य आजीविकाया अवसरा प्राप्ता

यात्रावसरे असौ अहमदा ादं आगरां दिल्लीं चापि गमिष्यति तस्य स्वागताभिनन्दनार्थ अहमदा ादस्य मो रा स्थले सरदार प ल स् डियम नाम्ना प्रख्याते विश्वस्य हत्तम क्रिके स्तेडियम प्रांगणे नमस्ते ट्रम्प इति कार्यक्रम समायोजयिष्यते

विमान पतनाद आरभ्य स्प्रेडियम स्थलं यावत् समायोक्ष्यमाणाया मार्ग प्रदर्शन्याश्चापि सर्वा सज्जता सन्ति सम्पूरिता नमस्ते ट्रम्प कार्यक्रमस्य अवसानानन्तरं ट्रम्प आगरानगरीं गमिष्यति आगरा नगरमपि ट्रम्पस्य स्वागतार्थमस्ति स्सज्जितम् ट्रम्पपरिवारेण तत्र ताजमहल भवनं निकषा सूर्यास्त समये होरावधिक कालो यापयिष्यते अपरत्र च दिल्लीनगरी चापि ट्रम्पस्य स्वागतार्थ स्तरामतितरां सम्दयता वर्तते एतदर्थ दिल्ल्या हैदरा ादहाउस भवने नानाप्रष्पाणि समानीय सुसज्जितानि सन्ति यत्र ट्रम्प संस्थास्यति हैदरा ाद हाउस अवने एव मोदि ट्रम्पयो मध्ये प्रतिनिधि मण्डल स्तरीयं मन्त्रणोपवेशनम् अनुष्ठास्यते

तदन् भूम्यधिनियम चापि रचिष्यते अमुनैतदपि घोषितं यत् नियमानाम् अधिसूचिती करणानन्तरं युववर्गेभ्य प्रतिश्रुत्यनुरूपं वृत्तेरवसराश्चापि सम्प्रदास्यन्ते राष्ट्रपति न्यायिकसम्मेलनम् राष्ट्रपति श्रीरामनाथकोविन्दः प्रावोचत् यत् सर्वसाधारणानां न्यायं यावत् सम्प्राप्तिं स्गमयित्मु आधारिक परिष्कारार्थ सर्वोच्च न्यायालयस्य कार्य श्लाघनीयमस्ति अम्नोक्तं यत् शताब्द प्रातनानि मूल्यानि निध्याय इत्थमेव संवेदनशीलता पुरस्सरं न्यायालयेन जैव विविधताया सतत विकासस्य च विषयाश्चापि सुतरां समाहिता सन्ति